राष्ट्रियान्वेषणाभिकरणेन तमिलनाड्राज्ये कृतानि सहसा अन्वीक्षणानि अन्वेषणानि च

खेलक्रीडास् इंडोनेशिया ओपन बैडमिन्टन प्रतिस्पर्धायां पी वी सिन्धू अन्त्यचक्र प्रविष्टा राज्यपालानां नियुक्तय प्रशासनेन अद्य कतिपयेष् राज्येष् राज्यपालाना नियुक्तय कृता

बिहारस्य राज्यपालं लालजी टंडनं मध्यप्रदेशस्य राज्यपाल नियुक्त वर्तते फाग् चौहान बिहारराज्यस्य नवीन राज्यपालत्वेन पदग्रहणं करिष्यति

यात्रेयं अगस्तमासस्य पंचमदिनांकात् प्रारप्स्यते श्रद्धालूनां प्रथमं दलं अपरे दिवसे पवित्रे गृहायां सम्प्राप्स्यति अगस्त मासस्य षोडशे दिनांके यात्रावसानं भविष्यति पवित्रग्हा इयं जम्मू संभागस्य पुंछजनपदस्य सीम्नि मंडी इत्यत्र स्थिता वर्तते एन आई ए राष्ट्रियान्वेषणाभिकरणेन अंसार उल्लाह तंकी प्रकरणेऽस्मिन् विभिन्न स्थलेषु सहसा अन्वेषणं कृतम् विगतसप्ताहे चतुर्दश रोपण सऊदी अरबात् भारते प्रविष्टे सति निगडिता सन् तेष् रोपा सन्ति यत् ते तमिलनाडुराज्ये अंसार उल्लाह तंकी प्रकरणं स्थापनाय सक्रियत्वेन चरन्ति

राजनाथसिंह रक्षामंत्रिणा राजनाथसिंहेन अद्य करगिलविजयस्य विंशतिवर्षपूर्णे सति द्रास इत्यत्र करगिल यूद्धस्मारके हुतिंगतेभ्य वीरभटेभ्य श्रद्धांजलय समर्पिता करगिलविजयदिवसस्य विंशतिवर्षपूर्यावसरे सप्ताहपर्यन्तं ञयोजनानि परिपाल्यन्ते

राजनाथसिंह वीरसैनिकै साकमपि मेलनं कृतवान् तेन चीनदेशेन समं वास्तविकनियन्त्रणरेखायां स्थिति समीक्षा अपि कृता रक्षामन्त्रिणा साकं प्रधानमंत्री कार्यालये राज्यमन्त्री डॉ जितेन्द्रसिंह अपि जम्मूकश्मीर गत अस्ति डॉ हर्षवर्धन केन्द्रीय विज्ञान प्रौद्योगिकी स्वास्थ्य परिवारकल्याणमंत्री डॉ हर्षवर्धन उक्तवान् यत् प्रधानमंत्रिण नरेन्द्रमोदिन न्यू इंडिया इति नवभारतस्य परिकल्पनां सुदृढीकरणाय वैज्ञानिकै सामाजिकं दायित्वं निर्वोढव्यं असौ अद्य हैदराबादस्थे वैज्ञानिकौद्योगिकान्संधानपरिषद प्रयोगशालायां वैज्ञानिकानाम् अधिकारिणां च समूहं सम्बोधयति स्म

बैडमिन्टन भारतीयाप्रगण्या बैडमिन्टनक्रीडिकया पी वी सिन्धूना अद्य उपान्त्यचक्रे चेन वाई इति चीन देशीयक्रीडिकां पराजित्य अन्त्यचक्रार्थं च स्वस्थानं सुनिश्चितम्